मध्यप्रदेशे राजनीतिकम् अस्थिरत्वं विवर्धते भाजपा कांग्रेस् इति दलद्वयमपि निज निज विधायकान् भोपालत बहि प्रेषितवत् एकविंशत्यधिक दविसहस्रतमाब्दीया जनगणना चरणदवये भविता विदेशमन्त्री एस जयशंकर न्यगादीत् यत् प्रशासनं ईरानत निष्कासितानां भारतीय नागरिकाणां स्रक्षायै कृतसंकल्पमस्ति सिंधिया भाजपा कांग्रेस्दलीयो वरिष्ठ कांग्रेस्नेता ज्योतिरादित्य सिंधिया अदय भाजपादले सम्प्रविष्ट

अत्रान्तरे वार्ताभिकरणान् सम्भाषमाण जे पी नड्डा अवादीत् यत् ज्योतिरादित्य सिन्धियाया भाजपादले समावेशनं तदीय दले कस्यापि पारिवारिकस्य सदस्यागमनवत् विद्यते असौ भाजपादले प्रम्ख नेतृत्वेन पदभारं सम्भालयिष्यति तत्रैव श्रीमता सिन्धिया भारतस्य भविष्यं प्रधानमन्त्रिण नरेन्द्र मोदिनो नेतृत्वे समूदीरितम् प्रोक्तं अहमपि प्रधानमन्त्रिण नेतृत्वे कार्याचरणं समीहे मध्यप्रदेश मध्यप्रदेशे राजनीतिकम् अस्थिरत्वं विवर्धते

कांग्रेस्दलीयै सर्वैरपि नेतृभि पूनरपि बहमत सिद्धत्वं सबलं प्रतिपाद्यते सूचनान्सारि भाजपादलीया विधायका ग्रूग्रामं प्रेषिता एकनवति कांग्रेस्विधायकाश्च जयप्रे एव स्थास्यन्ति

असौ संसद बहि वार्ताहरै सार्ध सम्भाषते स्म

विदेशमन्त्री विदेशमन्त्री एस जयशंकर न्यगादीत् यत् प्रशासनं ईरानत निष्कासितानां समेषामपि भारतीय नागरिकाणां सुरक्षाम् निधाय कृतसंकल्पमस्ति ईरानतः प्रत्यावर्तितानाम् सर्वेषामपि नागरिकाणां चिकित्सकीयं परीक्षणं विदेशमन्त्रिणा समाश्वासितम् विदेशमन्त्री अद्य राज्यसभायां सर्वमिदम् व्यज्ञापयत्

जना विशाल जनसम्मेलनेष् अस्मिन् काले भागं मा गृहणन्त् यदि केचित् कासम् अन्भवन्ति ज्वरं चान्भवन्ति तर्हि ते अन्येभ्य दूरे भवेय्